तृणमूल कांग्रेस् दलस्य वरिष्ठ नेता श्भेन्द्ः अधिकारी अन्ये चापि एतत् दलस्य नेतार भाजपादलं प्रविष्टवन्त देशे स्वस्थतामानं संवर्ध्य पंच नवति दशमलव चत्ः षट् परिमितम् संवृत्तम् अद्य जम्मू कश्मीरे जनपद विकास परिषद अन्तिचरणस्य अष्टचाक्रिकस्य च मतदानं शान्तिपूर्णं सम्पन्नम् सूचना प्रसारणमन्त्री भारतस्य एकपञ्चाशत्तम आन्ताराष्ट्रिय फिल्म महोत्सवाय पंचाशत् चलचित्राणां घोषणां कृतवान् क्रिकेट क्रीडा स्पर्धायां ऑस्ट्रेलिया दलेन भारतं अष्टक्रीडकानां हानिपुरस्सरं पराभूतम्

प्रधानमंत्री मोदी प्रधानमंत्री नरेंद्र मोदी न्यगादीत् यत् भारतीय उद्योगस्य क्षमतां प्रतिबद्धतां च जगत समक्षं उपस्थापनस्यसमुचित कालोयं समापन्न तेन उद्योगव्यवसायजगत् समाहूतं प्रोक्तं यत् आगामिषु वर्षेषु आत्मनिर्भर भारतस्य निर्माणाय यथाशक्ति प्रयतन्ताम् असौ अद्य दृश्यश्रव्यसंवादप्रणालिकया ऐषम एसोचर स्थापना सप्ताहस्य कार्यक्रमं सम्बोधयति स्म प्रधानमन्त्रिणा प्रोक्त यत् विश्वम् इदानी चत्थीं औद्योगिक क्रांतिं प्रति द्रतगत्या अप्रेसरत् अस्ति नव प्रविधिरूप पराणि भूरि संख्याकानि समाह्वानानि अथ तासां समाह्वानानां समाधानानि समक्षम् आयास्यन्ति प्रधानमंत्री प्रावोचत् यत् अनुसंधान विकास क्षेत्रयो निवेश संवर्धनीय एतदर्थ निजिक्षेत्रा अत्र निवेश अस्ति आवश्यक असौ सविशेषं अब्रवीत यत् निगमितक्षेत्राणां नियमनं भवत लाभे सहभागो वा सर्वत्रद्व अस्माभि जगत सृष्ठ नीतय यथाशीघ्रं अन्करणीया प्रधानमंत्रिणा भणितं यत् लाभ केंद्रितं दृष्टि सन्धारण प्रस्सरं सर्वमिदं व्यापक हितं निधाय स्वीकरणीयम् अस्माभि देश उद्यमं उद्यमिनश्च समर्थयति द्रयमपि एतत् युवभ्य भूरि अवसरान् दात् शक्नुवन्ति तेनोक्त यत् प्रशासनं भारते विनिर्माण संवर्धते एतदर्थं सततं प्रयासा परिष्काराश्च विधीयन्ते अत्रावसरे प्रधानमन्त्रिणा रतन टाटा वर्याय एसोचा एंटप्राइज़ ऑफ द सेंचुरी इत्याख्य प्रस्कार उपायनीकृत प्रधानमन्त्री न्यगादीत् यत् विगतेभ्य शतवर्षेभ्य एसोचप्तअथ टाटा समूह देशस्य अर्थव्यवस्थां कोटिश भारतवासिनां जीवनं सबलीकरणे रता सन्ति ध्येयमस्ति यत् एसोचप्रइत्येतस्य स्थापना गतशताब्दस्य विशे वर्षे विहिता आसीत्

शुभेन्दु तृणमूल कांप्रेस् दलस्य वरिष्टः नेता श्भेन्द् अधिकारी अन्ये चापि एतत् दलस्य नेतार भाजपादलं प्रविष्टवन्त केन्द्रीय मन्त्रिण अमितशाहस्य मिदनापुरे आयोजितायां जनसभायां दल प्रवेश कार्यक्रमोयं सम्पन्न

इत्थं देशे स्वस्थतामानं संवर्ध्य पंच नवति दशमलव चतुः षट् परिमितम् संवृत्तम् विगते अहोरात्रे संक्रमणात् मुक्तिमाप्तवतां संख्या भूयोपि ऊनस्रिंशत् सहम्रमिता संजाता स्वास्थ्य मन्त्रालयो ब्रते यत् इदानीं यावत् पंचाशत् सहस्रोत्तर पंच नवति लक्षमिताः जनाः स्वस्थाः अभूवन् तत्रद्वीमृत्यमानं देशे एक दशमलव चत्ः पंच परिमितम् विद्यते यत् हि अधिविश्वं सर्वाधिकं मृत्यमानमिदं विद्यते भारतीय चिकित्सानुसन्धान परिषदानुसारं कोरोना प्रारूप परीक्षणानि राष्ट्रे षोडश कोटि मितानि सम्पन्नानि

ध्यातव्यमस्ति यत् अस्य सुच्यौषधे प्रयोग न केवलं रोगिणां कृते अपि च सन्देहास्पदानां जनानां कृतेऽपि लाभप्रद वर्तते यतोहि अस्य प्रतिरोधक क्षमता सबला भवति कोरोना सम्बद्धानां सम्भावित प्रश्नां श्रृङ्खलायां मन्त्रालयेन प्रतिपादितम् यत् भारते विकसितस्य सूच्यौषधे प्रभाव अन्येषाम् देशानां समानमेव प्रभावोत्पादक अस्ति अस्माकं वार्ताहर प्रोक्तवान् यत् सूच्यौषधे परीक्षणं विभिन्नेष् चरणेष् वर्तते अथ च एतत् सूच्यौषधम् शीघ्रमेव वयं प्राप्तूं शक्नुम इत्यपि सर्वकारेण निगदितम् जम्मूकश्मीरे निर्वाचनम् अद्य जम्म कश्मीरे जनपद विकास परिषद अन्तिचरणस्य अष्टचाक्रिकस्य च मतदानं शान्तिपूर्ण सम्पन्नम् चरणेऽस्मिन् प्रात काले एकादशवादनपर्यन्तम् शून्य सप्त दशमलव षड्विंशति प्रतिशतम् मतदानम् अभूत् तत्रकश्मीर मण्डले अष्ट दशमलव षोडश प्रतिशतं जम्मूप्रान्ते च त्रि सप्त दशमलव षड्रिशत् प्रतिशतं मतदानं सम्पन्नम् एतस्मिन् चरणे अष्टाविंशति निर्वाचन क्षेत्रेष् मतदानानि सम्पन्नानि यत्र यस्मिन् त्रयोदश आसनानि कश्मीर मण्डलस्य पञ्चदश आसनानि जम्मूप्रान्तस्य अवर्तन्त प्रकाश जावडेकर सूचना प्रसारणमन्त्री प्रकाश जावडेकर अद्य भारतस्य एकपञ्चाशत्तम अन्तारांष्ट्रिय फिल्म महोत्सवाय त्रयोविंशति विशेष चलचित्राणां विंशति च इतराणां सामान्य चलचित्राणां घोषणां कृतवान् चलचित्राणि एतानि गोवायां समायोक्ष्यमाणे अन्तार्राष्ट्रिय फिल्म महोत्सवे प्रदर्शयिष्यन्ते